कोविडसन्देश प्रिया श्रोतार समस्तेऽपि देशे प्नः समेधमानेन विकराल कोरोना संक्रमणेन जनसामान्या भयाकुला दरीदृश्यन्ते अतः भवन्तः प्रार्थ्यन्ते यत् सूच्यौषधम् अवश्यमेव स्वीक्र्वन्त् असावधानतां नैवाचरन्त्

म्खावरकं सन्धारयन्त्

पाणिपादं च यथासमयं प्रक्षालयन्त्

अस्मिन् चरणे अष्टादश वर्षतोऽधिक वयो मितेभ्यसर्वेभ्य जनेभ्य कोविड सूच्यौषधस्य वितरणम् विधास्यते

साम्प्रतं यावत् षट् षष्टि लक्षाधिक द्वि कोट्यधिकै जनै अस्मिन् चरणे सुच्यौषधस्य स्वीकरणार्थ पंजीकरणमस्ति कारितम

येतेभ्य सार्ध पंचदशकोटितोप्यधिकानि सूच्यौषधानि जनेभ्य प्रय्क्तानि स्वास्थ्य मंत्रालयान्सारि राज्यानां केन्द्रशासितप्रदेशानाम् च पार्श्वे एकोनाशीतिलक्षमितानि सूच्यौषधानि सन्ति उपलब्धानि आगामीष् स्त्रिष् स्दिवसेष् स्राज्येभ्यः सप्तदशलक्षमितानि सूच्यौषधानि संप्रदास्यन्ते महाराष्ट्राय सम्प्रति यावत् त्रिषष्टि लाक्षाधिक एककोटिमितानि सूच्यौषधानि प्रदतानि राज्ये च सम्प्रति यावत् द्विषष्टिलक्षाधिक एककोटिमितानि सूच्यौषधानि जनेभ्यः सन्ति स्प्रयुक्तानि उत्तरप्रदेशाय च षड्रत्रिंशद्तर एककोटिमितानि सूच्यौषधानि उपलब्धीसन्ति कारितानि

केन्द्रेण विशेष सहायता रूपेण सर्वेभ्यः राज्येभ्यः संदत्ता इयं राशि अर्धमात्रया प्रय्क्त् प्रभवन्ति यया राज्यानि चिकित्सालयीय सन्नद्धतया सह उपकरणादिनी च क्रेत्म् शक्ष्यन्ति

घटनेयं भरूचस्थ पटेल वेलफेयर चिकित्सालये प्रातः सहसा अग्निदाहकारणात् जाता यस्यां षोडश कोरोना महमार्या उपचाररतै जनै सह अष्टादश जना कालकवलिता अभूवन् घटनामुपलक्ष्य प्रधानमन्त्रिणा गुजरातप्रदेशस्य म्ख्यमन्त्रिणा च गभीर शोक प्रकाशित

पश्चिम बंगाल असम केरल तमिलनाड् केन्द्रशासितप्रदेश प्दद्दचेर्या विधानसभाया मतगणना श्व भविता एतै सह लोकसभाया चत्र्णाम् आसनानां विधानसभाया द्वादश आसनानां प्रवृतस्य उपनिर्वाचनस्य अपि मतगणना श्व एव भविष्यति प्रात अष्टवादनात् मतगणना प्रक्रिया समारप्स्यते मतगणनाया परिणाम निर्वाचन अयोगस्य वेबफलके उपलब्धो भविष्यति निर्वाचन आयोगेन कोरोनाप्रकरणं निध्याय मतगणनाकेन्द्रेष् कठोरनिर्देशा प्रदता सन्ति

राष्ट्रपति रामनाथकोविंद प्रसिदधन्यायविद सोली सोराबजीवर्यस्य निधने शोकसंवेदनां प्रकटितवान् राष्ट्रपतिना एकस्मिन् ट्वीट संदेशे उक्तं यत् सोली सोराबजीवर्यस्य निधनेन भारतदेश न्यायप्रणाल्याप्रमुखस्तंभेन हीन अभवत् सः केष्चित् तादृक्षु जनेष् आसीत् ये संवैधानिक विधिभि न्यायप्रणालिभिश्च अत्यधिकरूपेण प्रभाविता आसन्

सूचनाप्रसारण मंत्री प्रकाश जावड़ेकर अपि प्रसिद्धन्यायविदः सोली सोराबजिनः निधने शोकं प्रकटितवान् श्रीमन् जावड़ेकर एकस्मिन् ट्वीट संदेशे उक्तवान् यत् राष्ट्र एकेन स्प्रतिष्ठितेन अधिवक्त्रा राष्ट्रस्तरीयेण च न्यायविदा हीन अभवत्

तिहाइकारागारे अजीवनबंधीभूतस्य प्राक्तनसंसदसदस्यस्य दीनदयालोपाध्याय चिकित्सालये चिकित्सा प्रचलन्नासीत् स कोरोनाग्रस्त आसीत् तिहाड़कारागारस्य महानिदेशक संदीप गोयल अकथयत् यत् शहाबुददीन अप्रैलमासस्य विंशति तालिकातः अनेन रोगेण ग्रस्तः आसीत् मोहम्मद शहाबुद्दीन सिवान क्षेत्रात् अनेकधा सांसदत्वेन चयनित अभवत् मुख्यमंत्री नीतीशकुमार शहाबुद्दीनस्य अवसाने शोकम् प्रकटितवान्

इति वार्ता